देशे सूच्यौषधाभियाने केन्द्रप्रशासनस्य निर्णयानुसारि शासकीय शासकीयेतर क्षेत्रयो कोविड सूच्यौषधीकरण केन्द्रणि अस्मिन् मासे आसप्ताहम् उद्घाटितानि भविष्यन्ति कोविडसंक्रमणस्य संवर्द्धित नूतनानि प्रकरणनि अभिलक्ष्य उत्तर प्रदेशे प्रथमकक्षात अष्ट मीकक्षापर्यन्तं विद्यालया मासस्यास्य एकादशदिनांक पर्यन्तं न समुद्घाटयिष्यन्ते देशे साम्प्रतं यावत् सप्ताशत्यिधिक षट्कोटि मितानि सूच्यौषधा नि जनेभ्य प्रदतानि सन्ति

भाजपा दलीय वरिष्ठनेता प्रधानमन्त्री नरेन्द्रमोदी अद्य पश्चिम बंगाल असम राज्ययो नैर्वाचनिक जनसभा सम्बोधयिष्यति

दैनिक संवर्धितप्रकरणेष् यानि राज्याणि श्रेणिबद्धानि कृतानि तेष् महाराष्ट्र पंजाब दिल्ली कर्नाटक हरियाणा छत्तीसगढ प्रदेशाश्च सम्मिलिता सन्ति केन्द्रीय सचिवेन राजीवगोबया गतदिवसे सर्वेषां राज्यानां केन्द्रशासितप्रदेशानां च मुख्यसचिवै आरक्षि महानिदेशकै स्वास्थ्यसचिवैश्व साकं उच्चस्तरीय समीक्षामंत्रणा विहिता

निर्णयानुसारि शासकीय शासकीयेतर क्षेत्रयो कोविड सूच्यौषधीकरण केन्द्रणि अस्मिन् मासे आसप्ताहम् उद्घाटितानि भविष्यन्ति केन्द्रप्रशासेन गतदिवसे पत्रमाध्यमेन सर्वाणि राज्यानि केन्द्रशासित प्रदेशाश्च निर्देशान्पालनाय आदिष्टानि